ब्राजील राष्ट्रपति गणतन्त्र दिवसस्य मुख्यातिथि च जाइर मेसियस बोलसोनारो चत्र्दिवसीय यात्रायां भारतं सम्प्रापयति केन्द्रीय मन्त्रिणा प्रहलाद जोशिना प्रोक्तं यत् जम्मू कश्मीर आतंकवाद अपाकरणं केन्द्र प्रशासनस्य प्राथमिकता विद्यते दिल्ली विधानसभा निर्वाचनेभ्य नामांकन प्रत्यावर्तनस्याद्यान्तिमो दिवस चीन प्रशासनेन कोरोना संक्रमणं रोद्धुं बहव उपाया विहिता प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी भणितवान् यत् अधिकाराणाम् अपेक्षया कर्तव्या सर्वापरि भवितव्या प्रधानमन्त्री राष्ट्रिय बाल प्रस्काै अलंकृतै ऊनपञ्चाशत् बालकैस्समं सम्भाषणे श्रीमोदी प्रोक्तवान् यत् अल्पवयसि एतै बालकै अन्द्रत कार्याणि प्रदर्शितानि राष्ट्रिय प्रस्कारै सम्मानित बालकानां प्रशंसां कर्वन् प्रधानमन्त्री प्रतिपादितवान् यत् इद गौरवास्पदं क्षणं विद्यते बाल शक्ति प्रस्कारा नवाचार सामाजिक सेवा शिक्षा खेल वीरता कला संस्कृति सदृश क्षेत्रेष् प्रदीयन्ते पुरस्कारेडस्मिन् पदकं प्रशस्तिपत्रं लक्षात्मक रूप्यकाणि पुरस्कार स्वरूपे प्रदीयते नागालैण्ड गणतन्त्रदिवस नागालैण्डे विभिन्न प्राशासनिक विभागै राज्य स्तरीय समारोह प्रदशन्यानानाञ्कृते सचिवालय प्लाजा कोहिमायां गणतन्त्र दिवसस्य सञ्जा चरमोत्कर्षे प्रचलन्ति प्रदेशस्य राज्यपाल आर एन रवि राष्ट्रिय ध्वजम् उत्तोलयिष्यति

असौ रविवासरे गणतन्त्र दिवस समारोहे मुख्यातिथित्वेन विराजयिष्यति श्री बोलसोनारो श्व राष्ट्रपतिं रामनाथकोविन्दं प्रधानमन्त्रिणं नरेन्द्रमोदिनं च मेलिष्यति

एतेष् मन्त्रिष् गिरीराज सिंह रविशंकर प्रसाद प्रहलादजोशी रमेश पोखरियालश्च समाविष्टा सन्ति मन्त्रिभि एतै विभिन्नपरियोजना समुद्घात्ति जम्मू कश्मीरेर प्रारप्स्यमाणे अभियानेऽस्मिन् मन्त्रिण प्रबलं व्याहृतवन्त यत् केन्द्रप्रशासनं प्रदेशस्य अस्य समग्र विकासाय प्रतिबद्धं वर्तते

श्रीनगरे डल सरोवरस्य जलम् अधिकांशत हिमवतं सञ्जातमस्ति येन श्रीनगर उपत्यकाया नगरेष् जलापूर्ति प्रभाविता जाता तत्र रात्रौ तापमान शन्यात् षड् डिप्री सेल्सियस अध आकलित य अस्यां ऋतौ अत्यधिकं न्यूनतम अंकित

द्रष्टिबाधित आरक्षणम् राष्ट्रिय दुष्टिबाधित संघेन दिव्यांगजनेभ्य पदोन्नतये आरक्षण नियम प्रभाविदशायाम् उच्चतम न्यायालयस्य साम्प्रतिक निर्णय प्रशंसित

नवशताश्च संक्रमिता सूच्यन्ते ग्रूवासर यावत् संक्रमणमिदं देशस्य ऊनविंशति प्रान्तेष प्रसुतमासीत थाईलैण्ड जापान दक्षिण कोरिया सिंगापर वियतनाम अमेरिकायामपि एकादश संक्रमित प्रकरणानि अभिज्ञातानि